लखनउ नगरे अनुवर्तमानासू सईद मोदी अन्ताराष्ट्रिय बैडमिण्टन् प्रतिस्पर्धासू अद्य पुरुषैकल वर्गीये निर्णायक चक्रे भारतस्य सौरभ वर्मा कोरियाया हियो क्वांग् हीं संमुखीकुरुते

आद्ये चरणेऽस्मिन् राज्यस्य छतरा पलामू गुमला गढ़वा लातेहार लोहरदम्गाख्याना षण्णां जनपदानां त्रयोदशस् निर्वाचन क्षेत्रेष् मतदानानि समायोज्यन्ते सकलान्यप्येतानि क्षेत्राणि नक्सल् वादिभि दुष्प्रभावितत्वा अतिसंवेदन शीलानि मन्यन्ते मतदानानां निर्विघ्नतया निष्पक्षतया च निष्पादनार्थं तत्र व्यापका सुरक्षा प्रबन्धा प्रकल्पिता सन्ति

गतदिने राष्ट्रपति भवने श्रीलंका राष्ट्रपतिना गोटाबाया राजपक्षेण समं मेलनक्रमे श्रीकोविन्द उद्गारम् प्राकाशयत् यद् भारत श्रीलंकया सार्थं स्वीयम् आर्थिक सम्बन्धं सदैव सुद्र धितम् इच्छुकं विद्यते

जम्मुकश्मीर संघर्षविरामोल्लंघनम् केन्द्रशासितस्य जम्मूकश्मीर प्रदेशस्य पूंछ जनपदे सीमा क्षेत्र वर्त्तीनि भारतीय सुरक्षा स्थात्राणि जनवसतीश्च लक्ष्यीकृत्य गतरात्रौ पुनरेकदा पाकिस्तानीय सैन्यै सहसा गोलिकायुध वर्षणमारब्ध्म प्रतिरक्षासूत्रै आकाशवाणी विज्ञापिता यत् पश्चात् तत्र तत्पैर भारतीय भटैरपि तदनुरूप प्रतिप्रहतम्

आगामिनो डिसेम्बर मासस्य षष्ठो दिनांक आवेदन प्रेषणाय अन्तिमा तिथिर्विद्यते